प्रधानमन्त्रिणा प्रोक्तं यत् भ्रष्टाचार जनानां धनस्य ल्ण्ठनम् स्वजनपक्षपात आतंकवादश्च इत पूर्वम् एतादृशं कदापि नैवावरूद्धम्

फ्रांस संयुक्तारबामीरात बहरीन चेति देशत्रयस्य यात्राया द्वितीये चरणे श्रीमोदी गतरात्रौ संयुक्तारबामीरातस्य राजधान्यां आबुधाबी नगयाँ सम्प्राप्त राष्ट्रियान्ताराष्ट्रिय पारस्परिकहित विषयेष नेतृद्रय मध्ये विस्तरेण परिचर्चा भविष्यति एकस्मिन ट्विट् संदेशे श्रीमोदिना उदीरितं यत् भारत संयुक्तारबामीरात देशयो मध्ये अबाधरीत्या प्रवर्तमानानि उच्च्स्तरोयोपवेशनानि द्वयो देशयो मध्ये प्रगाढ सम्बन्धानां साक्ष्यत्वेन विद्यन्ते तेनोदीरितं यत् अनया यात्रया देशद्रयमध्ये सम्बन्धा भूयोऽपि सुदृढा भविष्यति संयुक्तारबामीरात देशस्य आर्डर ऑफ जायेद सर्वोच्च नागरिक सम्मानं श्रीमोदिने प्रदास्यते महात्मगान्धिन सर्थैकशततमीं जयन्तीम् उपलक्ष्य प्रधानमन्त्री श्रीमोदी आबुधाबी शासकेन शेख मोहम्मद बिन जायदेन सह संयुक्तरीत्या एक स्मारकमुद्रांकम् उद्घाटथिष्यति इति आशास्यते आव्धाबी नगरत प्रधानमन्त्री बहरीनस्य यात्रां विधास्यति यात्रासौ शासकेन शेख हमाद बिन इसा अल खलीफा इत्येनन सह सम्भाषणं विधास्यति

प्रधानमन्त्री रूपेण द्वितीय वारं पदभास्ग्रहणानन्तरंम् अस्य कार्यक्रमस्य इदं तृतीयं संस्करणं भविष्यति आकाशवाण्या दूरदर्शनस्य च सर्वाभि वाहिनिभि कार्यक्रमोऽयं प्रसारयिष्यते राजनाथ सिंह भाजपा कार्यकर्तार रक्षामन्त्रिणा राजनाथसिंहेन प्रोक्तं यत् भारतं स्वीय प्रतिरक्षा क्षमता एतादृशं संवर्धत येन् विश्वस्य शक्तिशालिन देशा अपि अस्माकं देशं तजित् ं साहसं कत् नैव शक्नुवन्ति तेनोदीरितं यत् भारतेन प्रत्येकमपि दिनं स्वीयं क्षमतायां संवर्धनं विधीयते परञ्च कस्यचिदपि राष्ट्रस्य विरोधे नैव गतदिने लखनऊनगरे एकस्मिन् अमिनन्दन कार्यक्रमे भाजपा कार्यकर्तृणां जनसमूहं सम्बोधयता श्रीसिंहेन सप्तदशे लोकसभा निर्वाचने दलस्य कार्यकर्तृणां प्रयासा सबलं प्रतिपादितम् असौ रक्षाकार्मिकै सहापि सम्भाषितवान्

गतदिने गाजियाबादे भारतीय खाद्य स्रक्षा मानक प्राधिकरणे प्रथमं राष्ट्रिय खाद्य प्रयोगशालाम् उद्घाटयता तेन एतत् उदीरितम्

उत्तर प्रदेशे मथ्रा वन्दावन नगरयो श्रीकृष्ण जन्मोत्सव महता उत्साहेन समायोज्यते बाके बिहारी मन्दिर इस्कोन मन्दिर प्रेममन्दिर श्रीकृष्ण जन्मभूमि मन्दिराणि समेत्य सर्वाण्यपि मन्दिराणि स्सज्जितानि सन्ति उत्तर प्रदेश मुख्यमन्त्री योगी आदित्यनाथ अद्य मथ्रा नगरे जन्माष्टमी उत्सवे सहभागित्वं विधास्यति अवसरेऽस्मिन् राष्ट्रपतिना रामनाथ कोविन्देन जना वर्धापिता